भारत आस्ट्रेलिया देशर्योमध्ये प्रवर्तमानाया पञ्चदिवसीय क्रिकेटश्रृंखलाया तृतीय क्रीडा अपरिणा एव समाप्निं गता

शाह कृष्णांगार केन्द्रियगृहमन्त्रिणा अमितशाहेन कथितम् यत् अस्मदेशीयं कृष्णांगारक्षेत्रम् चतुर्विंशत्यृत्तर द्विसहस्रतमं वर्ष यावत् पञ्चट्रिलियनडालरत्मिकीम् अर्थव्यवस्थां कर्तुं क्षमम् वर्तते प्रधानमन्त्रिणश्च विचारं सार्थकतां भजिष्यते देशे कृष्णांगारागारेभ्य एकस्मिन्नेव स्थाने सर्वा सुविधा स्यू एतदर्थं गवाक्षैकस्या प्रणाल्या अद्य श्भारम्भ ं कुर्वन् श्रीशाहेनाप्रे कथितं यत् विगतेष षट्स् वर्षेष् कृष्णांगारस्योत्पादनम् नैकगृणितं जातम् तेन सबलं निगदितं यत् क्षेत्रेऽस्मिन् राष्ट्रोऽयं प्रधानमन्त्रिण आत्मनिर्भरभारतस्य विचारं साकारयिष्यति भाजपाध्यक्ष असम भाजपादलस्य दलाध्यक्ष जगत्प्रकाशनड्डावर्य सम्प्रति असमप्रान्तस्य सिल्चरनगरे अस्ति स संध्यायां ग्वाहाटीं प्राप्स्यति तत्र च स नैकेष् उपवेशनेष् सहभागितां विधास्यति आगामी असमप्रान्तीय निर्वाचनम्पलक्ष्य उपवेशनानि आयोजयिष्यन्ते विचारविनिमयप्रसंगेऽस्मिन् प्रदेशस्य मुख्यमन्त्रिणा साकं राष्ट्रियसंघठनसचिवादय नैके नेतार सहभागित्वं ग्रहीष्यन्ति अनेनैव सह पूर्वोत्तरीयेऽस्मिन् प्रमुख प्रान्ते नैर्वाचनिकगतिविधय गतिं प्राप्स्यन्तीति ज्ञायते पश्संक्रमणम् एवियन इन्फ्ल्एन्जा नामकं पश्ष् जायमानं संक्रमणम् आलक्ष्य पश्पालन मन्त्रिणा गिरिराजसिंहेन वार्ताहरा संबोधिता यत् वारत्रयं सर्वेडपि प्रान्ता निर्दिष्टा आसनु तथापि राज्यै उपय्क्तपदक्षेप न स्वीकृत येन स्थिति भयावहताम् अधिगच्छति दशसु प्रान्तेषु रोगस्यास्य प्रकरणानि प्राप्तानि सन्ति ज्ञातव्यमस्ति यत् संक्रमणस्यास्य लक्षणानि मानवेषु सम्प्रत्यपि नावाप्तानीति सुखदम्

अद्य प्रात भोपालस्थाया प्रयोगशालाया प्रारूपपरीक्षण परिणामै संक्रमणस्य पृष्टि जाता मयूरविहारस्य संजयसरोवरस्थानां पक्षीणां मारणस्योपक्रम आरब्ध उद्यानेऽस्मिन् ह्य मृतावाप्तानां हंसानां कारणेन क्षेत्रोऽयं अतिरिक्त ध्यानाकर्षकत्वेन घोषित इत पूर्वं देहलीसर्वकारेण गाजीपुरस्थं कुक्कुट आपणि दशदिवसाय पिहितम् राजधानीम् अस्मात् संक्रमणात् रक्षितुं अन्येभ्य क्षेत्रेभ्य खगानाम् आनयनमपि अवरोधितमस्ति नगरनिवेश केन्द्रसर्वकारेण अद्य संसूचितं यत् चत्रुत्तर द्विसहस्रतमवर्षादारभ्य चत्र्दशोत्तर द्विसहस्र वर्षस्य तुलनायां नगरपरिवर्तननिवेशे सप्तविंशत्युत्तरषडशत्प्रतिशमिता वृद्धि गता कोविड अपडेट देशे कोरोनामहामार्या स्वस्थतामानं संवध्य षण्णवति दशमलव चत्ःत्रि परिमितं संजातम् स्वस्थीभूतानां च संख्या षोडशसहम्राधिका अंकिता सम्प्रति देशे सक्रमितजनानां संख्या द्वाविंशति उत्तर द्विलक्षमिता अस्ति सन्दर्भेंऽस्मिन् सर्वेंऽपि मुख्यमन्त्रिण प्रधानमन्त्रिणा संबोधिता षोडशतालिकाया आरभ्य आरभमाणस्य सृच्यौषधिदानस्य सन्नद्वता प्रसंगेऽपि च तेन दिशानिर्देशा दत्ता संस्कृतवार्ताया संस्करणमिद इदानीम् आकाशवाणीत प्रसार्यते

प्रधानमन्त्री स्टार्टअप प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् देशे आयोज्यमानै आभासीय उपवेशनै देशस्य नवय्वकेभ्य य्वतिभ्यश्च रोचक वैश्विकमञ्च लभमाणोऽस्ति एकस्मिन् ट्वीटालेख्ये मोदिना निगदितं यत् प्रारम्भ स्टार्टअप इन्डिया इन्टरनेशनल समिट नामाख्यं नवोद्योगस्य आन्ताराष्ट्रिया आरम्भस्य प्रकल्प एतादृश एव एक मञ्च विद्यते यस्य च आयोजनं मासस्यास्य पञ्चदश षोडशतालिकयो समायोजयिष्यते तेन हि देशस्य युवान कार्यक्रमेऽस्मिन् सहभागितां कुर्यीरति प्रार्थितम् आयोजनस्यास्य उद्देश्यम् अस्ति औद्योगिक नैवेशिक आकादमिक वित्तकोषीयानां च नवोद्योगेच्छ्रनां यूनां मञ्चैकदानमिति प्रधानमन्त्री मृतकानुदानराशि प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रिय आपदामभिलक्ष्य दिवंगतेभ्य प्रत्येकमपि जन् अनुग्रहराशित्वेन द्विलक्षमितं धनप्रदानस्य स्वीकृति प्रदत्ता महाराष्ट्रस्य भण्डाराजनपदे चिकित्सालये भस्मीभूतानां परिजनेभ्य राशिरियं प्रदीयते

चीनस्य सार्वकारिक प्रसारणमाध्यमेन निगदितं यत् विशेषज्ञानां दलमिदं गुरूवासरे चीनदेशस्य परिभ्रमणं करिष्यति

ध्यातव्यमस्ति यत् चीन देशेन अस्य तथ्यस्यास्य पृष्टिन कदापि विहिता तेन च विशेषज्ञानां दलागमनस्यानुशंसापि विलम्बेन विहिता विगतवर्षस्य मई मासे विश्वस्वास्थ्यसंघटनस्य चतुर्णवत्युत्तरैकशत देशानां संचालनसमित्या अस्या महामार्या संक्रमणहेतो निष्पक्ष निष्कर्षाय स्वतन्त्रनिरीक्षणस्य अनुशंसा विहिता आसीत् चित्रफलकोत्सव समायोज्यमाने एकपञ्चाशतत्तमे अन्ताराष्ट्रिय भारतीय चल चित्रपटोत्सवे बांग्लादेश विशेषकेन्द्रबिन्दौ स्थास्यति प्रसंगेऽस्मिन् तस्य देशविशेषस्य चलचित्रीय योगदानेष् चित्रफलकीय कौशलेष् च विशेषबलं प्रदास्यते उत्सवोऽयं अस्य ख़िष्टीयमासस्य षोडशदिनांकादारभ्य चतुर्विंशतिदिनांकं यावत् गोवाप्रान्ते भविष्यति प्रथमवारम् आयोजनमिदं कोरोणाकारणेन हाईब्रिड इति प्रारूपे आयोजिष्यते युवामहोत्सवरिजिज् एकविंशत्युत्तरद्विसहस्रतमस्य राष्ट्रिय युवासंसद समारोहस्य अद्य अन्तिमं सत्रम् संसद केन्द्रियकक्षे समायोजितम् राज्यानां केन्द्रशासितप्रदेशानां च चत्रशीति विजेतार संसद केन्द्रियकक्षे उपविष्टा आसन् यत्र च लोकसभाध्यक्षः राज्यसभाया उपसभापति केन्द्रियसर्वकारस्य युवाकार्य एवं खेलमन्त्री किरणरिजिज् वर्यादयश्च आसन् आयोजनेऽस्मिन् एकोनत्रिशत् राष्ट्रस्तरीयविजेतार अपि पुरस्कृता